मतगणना आम आदमी पार्टीति दलेन दिल्ल्यां तृतीय वारं सत्ता रूढाय स्वीय शक्ति प्रदर्शिता दलेन सप्तति सदस्यात्मिकायां दिल्ली विधानसभा निर्वाचनानां मतगणनायां षड्विंशति आसनानि विजितानि सप्तत्रिंशत् आसनेष् च अग्रेसरति भाजपादलं च पञ्च विधानसभा क्षेत्रेष् आसनद्वयं विजितम् दिल्ल्यां म्ख्यमन्त्री अरविन्द केजरीवाल नवदिल्ली विधानसभा आसनात् अग्रेसरति

तेन दिल्ली मुख्यमन्त्रिणे अरविन्द केजरीवालाय श्भाशया प्रकटिता दिल्ली न्यायालय दिल्ल्या एकेन न्यायालयेन अद्य बिहारस्य म्जफ्फरप्र आश्रय गृहे बहभि बालिकाभि द्वष्कर्म हिंसा प्रकरणे च आरोपित बृजेश ठाकुर अन्येभ्य एकादश जनेभ्य आजीवन कारावास दण्ड श्रावित

निर्मला सीतारमण वित्त मंत्रिणा निर्मला सीतारमणोक्तं यत् वैदेशिक निवेशका भारतदेशे विश्वसन्ति लोकसभायां वर्तमान आगामि सामान्य आय व्यय पत्रके चर्चयता तयोदीरिता यत् आर्थिक वृद्धये निवेशोद्देश्ये बैंकानि स्सज्जितानि सन्ति प्रशासनं चत्र्विंशत्यधिक दविसहस्र पञ्चविंशत्यूत्तर दविसहस्रतम वर्ष पर्यन्तं आधारभूत विकासे लक्षैक कोट्यधिक निवेश करिष्यति तयोक्तं यत् देशस्य अर्थव्यवस्था अग्रेसरति

कुसुमांज्ल्यानन्तरं दलस्य मुख्यालये श्री नड्डा प्रोक्तं यत् दीनदयाल उपाध्याय महान् विचारक प्रदर्शक आसीत् लोकसभा लोकसभा अदय आगामि मार्च मासस्य दवि तारिकां यावत् स्थगितम् आय व्यय पत्रकस्य द्वितीय सत्रं मार्च द्वि दिनांकत प्रारप्स्यते लोकसभायामद्य आदिवासी सम्दाय विधेयक कर्णाटके पारितो जात विधेयकोऽयं सदने बहमतेन अन्शंसित राज्यसभायां पूर्वमेव विधेयकोड्यं पारितो जात उच्चन्यायालय जामिया दिल्ल्यूच्चन्यायालयेन दिसम्बर पञ्चदशे जामिया मिलिया इस्लामिया घटनाया न्यायालयस्यान्वीक्षणे विशिष्टान्वीक्षण याचिकायां केन्द्रत प्रत्युत्तरम् आदिष्टम् मुख्य न्यायाधीशेन डीएनपटेलेन न्यायमूर्ते सीहरिशंकरस्य च पीठेन जामिया विद्यार्थिन याचिकायां केन्द्र दिल्ली प्रशासन आरक्षि दलाय च आदेश प्रसारित ज्ञम्मू परियोजना केन्द्रशासित प्रदेशे जम्मू कश्मीरे अर्थव्यवस्थां प्रोत्साहयित् विकास कार्यक्रमाश्च विवर्धयित्म आगामि मार्च मासं यावत् दवि सहस्राधिक महत्त्वपूर्ण परियोजना प्रपूरिता भविष्यन्ति श्रीनगरे उपवेशने वित्त विभागीय आय्क्तेन डॉ अरुण क्मार मेहतावर्येण इदं सूचितम्

मध्यप्रदेशस्य राजधान्यां भोपाले राष्ट्रीय जल सम्मेलने विशेषज्ञा जल संकटस्य विभिन्न प्रकरणेष् चर्चयन्ति